स्थानीयस्य मेगा फूड पार्क इत्यभिधेयस्य आधारशिलां अस्थापयत् प्रधानमन्त्रिणा रोहतके आवासीय परिसरस्य उद्घाटनं कृतम् प्रधानमन्त्रिणा एनडीए प्रशासनस्य शतदिवसेष् कृतानि कार्याणि उक्तानि तेन उक्तं यत् प्रशासनस्य दवितीयं कार्यकालम् देशस्य विकासः परिवर्तनम् विश्वासश्च विद्यन्ते स हरियाणाया रोहतके जनसभां सम्बोधयन्नासीत्

यत् अद्धितीयम् अस्ति

जावडेकर शतदिवसा प्रधानमन्त्रिण नरेन्द्रमोदिन नेतृत्वे एनडीए प्रशासनस्य द्वितीयस्य कार्यकालस्य शतदिवसा व्यतीता एष् शतदिवसेष् बहनि ऐतिहासिकानि महत्वपूर्णानि च सोपनानि उत्थापितानि सूचना प्रसारण मन्त्री प्रकाश जावडेकर प्रशासनस्य उपलब्धिनां विषये प्रकाशयिंत् नवदिल्ल्यां वार्ताहराणां सम्मेलनं सम्बोधयन्नस्ति चन्द्रयान चन्द्रयान दवितीयस्य लैण्डर विक्रमस्य भागस्य मध्ये सम्पर्क विच्छिन्न आसीत् तस्य क्षेत्रस्य संकेत प्राप्त अस्य ज्ञानं भारतीय अन्तरिक्ष अन्सन्धान् केन्द्रस्य अध्यक्ष के सिवन अयच्छत् इदानीं विक्रमेण सम्पर्क न साधित विक्रमेण सम्पर्क साधयित् पूर्णतया प्रयासा जायन्ते

नवदश वर्षीया बियांका ग्रैंड स्लैम प्रतियोगितां प्रथमवार विजितवती